भारतीय क्रिकेट नियन्त्रण परिषदा आगामिनः ऑक्ट्बर मासस्य द्वितीय दिनांकात् दक्षिणाफ्रीकां विरुध्य स्वदेशे समारप्स्यमाणायै क्रिकेट निकष स्मर्धा शंखलायै पञ्चदश सदस्यात्मकं भारतीय क्रीडक वृन्दं ह्यः समुद्धोषितम्

एतद योजनान्तर्गत लघ् क्षुद्रस्तरीयाः कृषकाः षष्टि वर्ष पूर्तेः समननतर प्रतिमासं सहस्र त्रय रूप्यकाणि सेवोत्तर वेतनत्वेन प्राप्स्यन्ति आकलनान्सारि अनया योजनया झारखण्डस्य दशलक्ष मिताः अशेष देशस्य च पञ्चकोटि संख्यकाः कृषकाः लाभान्विताः भवितारः एतदतिरिच्य प्रधानमन्त्रिणा उद्योगिनां स्वयमुद्योगिनां च कृते राष्ट्रिय सेवोत्तर वेतन योजनायाः अपि आरम्भः कृतः

वरिष्ठा भारतीय राजनयिका विजय ठाकुर सिंहः गतदिवसे जिनेवायां संयुक्तराष्ट्रिय मानवाधिकार परिषदः प्रमुखां मिशेल् बैचलेट् महाशयां मेलित्वा सन्दर्भेडस्मिन् तां प्रति भारतस्य चिन्तां सविस्तरं विज्ञापितवती सहैव तया जम्मू कश्मीरे सप्तत्यधिक त्रिशत तम संविधान धारायाः निरसनाऽनन्तरम् अन्क्रमं जायमानायाः सामान्य स्थितेः अपि विषये सा विज्ञापिता श्रीमत्या सिंहेन बैटलैट व्याहृता यद् यथार्थः अयं विद्यते यत् कश्मीर मानवाधिकार रक्षायै आक्रोशं विदधानः पाकः एव तत्र चिरन्तन्याः पीडायाः आततेश्च कारणं विद्यते विद्यामन्त्रालयः अफगानिस्तानम् ट्रम्पः अफगानिस्ताने तालिबानीयैः आतंकिभिः सार्थं पूर्व निर्धारितस्य सम्भाषणस्य अमेरिकीय राष्ट्रपतिना डॉनल्ड ट्रम्पेण सद्यो विहितं निरसनम् अभिलक्ष्य भारतेन प्रोक्तमस्ति यत्तत्र समनुष्ठेयायां कस्याञ्चिदपि शान्ति प्रक्रियायां स्थानीय अफगानिस्तानीय प्रशासनस्य तत्रत्य जनतायाध सम्मति ग्रहणं समपेक्षितम् आसीत् विदेश मन्त्रालयीयः प्रवक्ता रवीश कुमारः अब्रवीत् यद भारत सन्दर्भेडस्मिन् जायमानासः निखिलाः घटनाः निकटतया निरीक्षते

देशत्रयस्य यात्राक्रमे श्रीकोविन्दः पारस्परिक राजनीतिक सांस्कृतिक व्यापारिक च सम्बन्धं सुद्रढयित् सम्प्रति स्विटजरलैण्ड सम्प्राप्तोऽस्ति स्विटजरलैण्डेन समं भारतस्य द्रढसम्बन्ध विषयं प्रस्कृत्य भारतीय समंदायं सम्बोधयन् राष्ट्रपतिः अब्रवीत् यत् आविष्काराणां सन्दर्भे स्विटजरलैण्डं जगतः नेतृत्वं विदधाति भारतथाईलैण्डसिसिभ्यासः मेघालये उमरोई स्थलस्थे वैदेशिक प्रशिक्षण केन्द्रे अस्य मासस्य षोडशतः ऊनत्रिंशं दिनाड़कं यावत् भारत थाईलैण्ड देशयोः सैन्यबलाभ्यां संयुक्त सैन्याभायासो विधास्यते